प्रधानमन्त्रिणा जना अध्यर्थिता यत् अध्ना कल्पकानामं निषेधस्य महती आवश्यकता अस्ति

भारत दक्षिणाफ्रीका देशयो महिलानां विंशतिं प्रति विंशतिं क्रिकेट् श्रृंखलाया तृतीयास्पर्धा अद्य सूरत नगरे

आकाशवाणीत अद्य मन की बात इति कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी प्रात धावनसमये अवकरान् उत्थापयित् नवीनस्य पदस्य योजनां प्रति राष्ट्रस्य ध्यानम् आक़ष्टवान् राष्ट्रपित् महात्म गांधिन स्वप्नं प्रयित्म् अयम् एक अभिनव अभ्यासोऽस्ति प्रधानमन्त्रिणा अक्तूबर मासस्य एकत्रिंशत् दिनाइके सरदार वल्लभ भाई पटेलस्य जयन्त्यां जना रन फॉर यूनिटी इत्यत्र भागं ग्रहीत्म् आग्रहिता

अस्मिन् विषये श्री मोदिना प्रोक्तं यत् सम्पूर्ण विश्व भारतमेव पश्यति येन पर्यावरणस्य संरक्षणदिशि अग्रणी भूमिका उढा प्रधानमन्त्रिणा जना अध्यर्थिता यत् ते उग्रतमालं त्यजन्त् प्रधानमन्त्रिणा जना निवेदिता यत् सामाजिक अन्तर्जाले भारत की लक्ष्मी इत्यस्य हैशटैग माध्यमेन प्रयोगं क्र्वन् स्वकीयानां प्रत्रीणाम उपलब्धिनां वर्णनं कुर्वन्त्

भारतेन प्रोक्तं यत् सैन्य शासनं पाकिस्तानस्य परम्परा अस्ति न त् भारतस्य युगांडादेशस्य कम्पालानगर्या चतृष्षाष्टितमे राष्ट्रमण्डलस्य संसदीय सम्मेलने पाकिस्तानस्य संसदीय प्रतिनिधिमण्डलेन कश्मीरस्य विषय उत्थापित आरोपितश्च यत् भारतीय सैन्यबलेन कश्मीर तन्त्रीकृत भारतीयप्रतिनिधिमण्डले सम्मिलिता भाजपा संसद सदस्या रूपागांग्ली अन्ये सदस्याश्च पाकिस्तानेन कृतस्य द्वष्प्रचारस्य विरोधं विहितवन्त तैरुदीरितं यत सैन्यशासनस्य परम्परा पाकिस्ताने अस्ति

अधिकारिभि सूचितं यत् राज्यस्य विशिट उपाधि समाप्त

भारतीय समयानुसारेण स्पर्धेयं सायं सप्तवादनात् प्रारप्स्यते